उच्चस्तरीय केन्द्रीय दलमेक दिन द्वय यात्रा प्रसंगे कश्मीर वर्तते देशे केन्द्रप्रशासनेन लोक कल्याणाय प्रारब्ध योजनानां प्रवर्तनं यथा कश्मीरेऽपि भवेत् तदर्थं राज्ये क्षेत्र चयनं वर्तते यात्रायाः औचित्यम् ऊनविंशत्यधिक द्रिसहस्रतम ख्रीस्ताब्दीयायां पञ्चचत्वार्रिशत्तमायां वर्ल्ड स्किल्स कज़ान प्रतियोगिता मालिकायाम् एकं सुवर्णपदकम् एकं रजतपदकं कांस्यपदक द्वयं च विजित्य भारतीय दलेन इतिहासो विरचितः

गतसप्ताहे सोमवासरे उपत्यकायां प्राथमिक विद्यालयाः प्नरुद्धाटिताः विद्यालयानां वर्तमानस्थिति विषये गतवासरे वार्ताहरैः भाषमाणः कश्मीरस्य शिक्षा निदेशकः यूत्स मलिकः प्रावोचत् यत् विद्यालयेष् गतसप्ताहे शिक्षकाणां छात्राणां च उपस्थितिः सन्तोषावहा अवर्तत

देशे केन्द्रप्रशासनेन लोक कल्याणाय प्रारब्ध योजनानां प्रवर्तनं यथा कश्मीरऽपि भवेत् तदर्थं राज्ये क्षेत्र चयनं वर्तते यात्रायाः औचित्यम् सप्तत्यृत्तर त्रि शतमित्यस्य विशिष्टानुच्छेदस्य प्रभावकारणात् केन्द्रप्रशासनस्य योजनाया राज्यवासिनो वव्विता अवर्तन्त समृहोऽयं जम्मुकश्मीर अथ लद्दाखे च चिकित्सा विद्यालय महाविद्यालय प्रभृतीनां विकास सौविध्यानां समीक्षणं विधाय यथाशीप्रं कार्यं प्रकल्पयित् ं पदक्षेपं विधास्यति येन जना लाभान्विता स्यू

न्यायमूत्योः श्र् बानुमती ए एस बोपन्नयोः खण्डपीठेनैकेन प्रोक्तं यत् ताभ्याम् अद्य चिदम्बरस्य याचिकाद्रयमभिलक्ष्य प्रवर्तन निदेशालयीय वादश्रवणं विधास्यते

द्विसप्नति वर्षीया सा मुम्बय्यां सोमवासरीये निशीथे दिवंगता हिमाचलप्रदेशे समुत्पन्ना इयं त्रिसप्तत्यधिकोनविंशति शततम ख्रीस्ताब्द दलीया भारतीयारक्षिसेवाधिकारिणी अवर्तत अनया नैकानि जटिलानि अपराध प्रकरणानि स्वचातुर्येण समाधितानि राष्ट्रपतिपदक राजीवगान्धि पुरस्कार समेतैः नैकैः सम्मानैः इयं सभाजिता

सप्ताधिक द्विसहस्रतम वर्षात् इदानी यावत् भारतस्य इय सर्वोत्कृष्टा प्रस्तुतिरवर्तत जल प्रविधि श्रेण्या एस् अश्वत्थ नारायणेन सुवर्णपदक विजितम् अन्तर्जालीय प्रविधि प्रतिस्पर्धासु प्रणव नुटालपतिना रजतपदकमधिगतम्